प्रधानमन्त्रीकृषकसम्माननिधियोजनाद्रारा लाभान्विता भवन्ति देशस्य कृषकपरिवारा देशस्य महत्वपूर्णचन्द्रयानस्य प्रक्षेपणं भविष्यति श्व अपराह्ने श्रीहरिकोटा स्थितप्रक्षेपणकेन्द्रात् बीसीसीआई ति मण्डलेन आगामीक्रिकेटस्पर्धायै भारतीयक्रीडकानां चयनं कृतम् शीलादीक्षित दिवंगताया एकाशीतिवर्षीया दिल्ल्या पूर्वमुख्यमन्त्रिण शीलादीक्षितस्य पार्थिववप् अद्य अपराह्न अग्नीसाद् अभवत् अन्त्येष्टिकर्मणि सोनियागांधी प्रियकागांधी गृहमन्त्री अमितशाह दिल्ल्या मुख्यमन्त्री अरविन्दकेजरीवालश्च उपस्थिता आसन् रामचन्द्रपासवान लोकजनशक्तिपार्टीति दलस्य संसत्सदस्य रामचन्द्रपासवान अद्यअपराहणे नवदिल्ल्यां निधनम्पगत राममनोहरलोहियाचिकित्सालये तस्योपचार प्राचलत् दिवंगतो रामचन्द्रपासवान बिहारे समस्तीपूर लोकसभासनात् सांसद अवर्तत मांगेरामगर्ग दिल्ल्यां भारतीयजनतापार्टीति दलस्य पूर्वाध्यक्ष मांगेरामगर्ग अद्य प्रात एकस्मिन् प्रशासनेतरचिकित्सालये पञ्चताङ्गत दव्याशीतिवर्षीयो गर्ग कतिपयकालात् अस्वस्थ अवर्तत तस्य पार्थिववपु दिल्लीस्थे भाजपाकार्यालये स्थापितम् यत्र दलस्य नेतार कार्यकर्तारश्च दिवङ्गतनेत्रे श्रद्धांजलीन् समर्पयन्ति प्रधानमंत्रीनरेंद्रमोदी मांगेरामगर्गस्य निधने शोकं प्राकाशयत् श्रीमोदिनोक्तं यत् दिल्ल्या साकं तस्य प्रगादसम्बन्ध आसीत् यद् हि निस्वार्थभावेन जनसेवायां परिलक्ष्यते स्म निगदितं च यत् श्रीगर्गेण राष्ट्रियराजधान्यां भाजपादलस्य प्रतिष्ठायै महत्वपूर्णा भूमिका निर्व्यूढा भारतीयजनतापार्टीति दलस्य कार्यवाहकाध्यक्ष जगत्प्रकाशनड्डा समेत्य विविधनेतृभि स्वीया संवेदना प्रकटिता कृषकसम्माननिधियोजनान्तर्गतं प्रधानमंत्रीकृषकसम्माननिधियोजनान्तर्गतं देशस्य द्वात्रिशल्लक्षाधिकसप्तकोटि कृषकपरिवारेभ्यो प्रथमद्वितीयचरणयो राशि प्रदत्त प्रत्येकं परिवाराय द्विसहस्रूप्यकाणि प्रदत्तानि आधिकारिकस्रोतोभि सूचितं यत् लाभान्वितकृषकाणां सूचौ उत्तरप्रदेश आन्ध्रप्रदेश महाराष्ट्र राज्यानि क्रमश प्रथम द्वितीय तृतीयक्रमे विद्यन्ते चन्द्रयानम् भारतस्य द्वितीयं चन्द्रयानं पूर्णतया प्रक्षेपणाय सज्जितम् तस्य प्रक्षेपणं श्व अपराह्ने त्रिचत्वार्रिशत् मिनटोत्तर द्वि वादने सतीशधवनान्तरिक्षकेन्द्रात् भविष्यति जगतप्रकाशनड्डा भारतीयजनतापार्टीति दलस्य कार्यवहाकाध्यक्ष जगतप्रकाशनड्डा दलस्य कार्यकर्तातृन् प्रधानमन्त्रिण नरेन्द्रमोदिन मार्गस्य अनुसराणाय अध्यार्थयत् मुम्बय्यां अद्य महाराष्ट्रस्य राज्यकार्यकारिण्योपवेशने श्रीनड्डा प्रावोचत् यत् प्रधानमन्त्रिण कार्यबलेन नूतना राजनीतिकसंस्कृति विकसिता निगदितं च यत् दलस्योद्रेश्य कांप्रेसम्क्त भारतस्य निर्माणं विद्यते आय्ष्मानभारतयोजनाया सफलतामुल्लेखयन् श्रीनड़डा प्रत्यपादयत् यत् प्रधानमन्त्रिण नरेन्द्रमोदिन राजनीतिकेच्छाशक्त्या एव देशे योजनेयं संप्रवृत्ता योगी आदित्यनाथ उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ अद्य सोनभद्रगोलिकाप्रहारपीडितान् अमिलत् तेभ्य प्रशासनपक्षत सर्वसभव साहाय्य च समाश्वासयत् अस्माक वार्ताहरेण सूचित यत् मुख्यमंत्री आरक्षिमहानिदेशकेन मुख्यसचिवेन च साक पीडितपरिवारान् मेलित् मध्याह्रे उम्माहग्रामम् उपगत उपवेशने ग्रामवासिभि साक्षात् मुख्यमंत्रिणे निवेदितम्

यस्मिन् विराटकोहली रोहितशर्मा शिखरधवन मनीषपाण्डेय ऋषभपन्त रवीन्द्रजडेजा सहिता अन्यक्रीडका सम्मिलिता सन्ति महेन्द्रसिंहधोनी आसु स्पर्धाषु न क्रीडिष्यति